प्रशासनेन कोविड संक्रमित रूग्ण जनेभ्य सौविध्य प्रदानार्थ सप्तदश महत्वपूर्णानि चिकित्सकीय प्रकरणानि आयातार्थम् सन्ति अनुमतानि

अतः भवन्तः प्रार्थ्यन्ते यत् सूच्यौषधम् अवश्यमेव स्वीक्वन्त्

सहैव सुरक्षाया सङ्कल्पत्रयं नूनमेव परिपालयन्तु मुखावरकं सन्धारयन्तु

पाणिपादं च यथासमयं प्रक्षालयन्तु

चिकित्सीय ऑक्सीजन इत्यस्य आपूर्तो परिशोधनाय प्रधानमंत्रिण आध्यक्षे एकस्मिन् उच्च स्तरीयोपवेशने निर्णयोऽयं निर्णीत प्रधानमंत्रिणा निर्दिष्टम् यत् एतानि ऑक्सीजन कंसेंट्रेटर्स इत्याख्यानि उपकराणि शीघ्रतया क्रेतव्यानि तानि उच्च प्राथमिकता धायिश्य राज्येभ्यप्रेषितव्यानि च पूर्वस्मादेव स्वीकृतानि त्रयोदशाधिक सप्तशत संख्याकापीएसए ऑक्सीजन संयंत्राणि अतिरिच्य पीएम केयर फंड इति कोशात् पंचशत नवीनेभ्य पीएसए ऑक्सीजन संयत्रेभ्य अपि स्वीकृति अस्ति प्रदता पीएसए संयंत्राणि जनपद मुख्यालयेभ्य द्वितीयस्तरीय नगराणाम चिकित्सालयेभ्यश्च तरल चिकित्सीय प्राणवायो आपूर्तिम् करिष्यन्ति एतानि शतसंयंत्राणि पीएसए डी आर डी ओ अपि च सीएसआईआर द्वारा विकसित स्वदेशी तकनीक माध्यमेन प्रयोक्ष्यन्ते पीएसए इति संयंत्राणाम् स्थापनया अपि च जंगमप्राणवायो क्रयणेन प्राणवायो आपूर्तौ पर्याप्तमात्रायां वृद्धि भविष्यति

प्रशासनेन देशे कोविड महामार्या स्थिति कारणेन समूत्पन्न महत्वपूर्ण चिकित्सा उपकरणानां वर्धमानां याचनामवलोक्य उपकरणानाम् आयात प्रकिया सम्पूरितास्ति केन्द्र प्रशासनेन एतदर्थ आयातकेभ्यः आवश्यकानां सप्तदश चिकित्सा उपकरणानाम् आयात समनुमत

नृतन प्रावधानानाम् अंतर्गतं सीमा शुल्कत त्वरित स्वीकृते पश्चात् आयातकै अनिवार्यरूपेण घोषणापत्रं प्रदेयं भविष्यति इत्थं विहिते सति प्रक्रियात्मक कारणेन आवश्यक चिकित्सा उपकरणानां वहने सम्भावित शैथिल्यमपि न भविष्यति

अस्मिन् चरणे चत्रशीति लक्षाधिका मतदातार विधानसभाया पञ्चत्रिंशदासनेष् त्यशीत्युत्तर द्विशताधिकानां प्रत्याशिनां राजनीतिकं भागधेयं निर्णेस्यन्ति निर्वाचनाधिकारिणा प्रोक्तं यत् निर्वाचनायोगेन अष्टमान्तिमे चरणे स्वतंत्रं निष्पक्षञ्च मतदानं सुनिश्चेत्र सुरक्षाया सुदृढ प्रबन्धा विहिता सन्ति एतदर्थ केन्द्रीय बलाना न्यूनान्न्यून एकचत्वारिशद्तर षट् शत गुल्माना नियोजनस्य निर्णयो विहितोऽस्ति येष् चतुर्विशत्युतर द्वि शतमिता केन्द्रीय स्रक्षा भट ग्ल्मा बीरभूम जनपदे नियोजिता सन्ति

स्वास्थ्यविभाग पक्षतः प्रख्यापितायाम् एकस्यां सूचनायां पश्चिम बंगाले मंगलवासरे संक्रमणस्य सार्ध षोडश सहस्र प्रायाणि नूतन प्रकरणानि समक्षमायातानि आसन् अनेन साकमेव प्रदेशे संक्रमितानाम् संख्या समेध्य पञ्च चत्वारिंशदुतर त्रि शताधिक षट्सप्तति सहस्राधिक सप्तलक्षमिता जातास्ति प्रधानमन्त्रिणा श्रीमोदिना बंगालस्य मतदातार अध्यर्थिता यते मतदानसमये कोविड दिङ्निर्देशानाम् अनुपालनम् अवश्यमेव कुर्यु सहैव प्रधानमंत्रिणा एकस्मिन् ट्वीट संदेशे जना लोकतंत्रस्य रक्षायै मतदानाय अपि आवाहिता ध्यानास्पदमस्ति यत् मतदानं प्रातः सप्तवादनतः सायं सार्ध षड्वादन पर्यन्तम् आयोज्यते संस्कृतवार्ताया संस्करणमिदम् इदानीम् आकाशवाणीत प्रसार्यते

स्वास्थ्य तथा परिवार कल्याण मंत्रालयेन निगदितं यत् विभिन्नराज्यानाम् केन्द्रशासित प्रदेशानां च पार्श्वे संप्रत्यपि षड् लक्षाधिक एककोटिमितानि सूच्यौषधानि सन्ति अवशिष्टानि देशे प्रायशः पंचदशकोटिजनेभ्यः कोविड सूच्यौषधानि प्रदतानि त्रिणवत्यधिकेभ्यः स्वास्थ्यकर्मिभ्यः प्राथम्येन अपि च एकषष्टिलक्षेभ्यश्च द्वितीयस्तरीयमपि सूच्यौषधमिमं साफल्येन अस्ति प्रदतम्

उत्तराखण्ड राज्ये कोविड संक्रमणस्य समेधमान प्रकरणाना कारणेन चतुर्धाम यात्रा स्थगितीकृतास्ति मुख्यमंत्री तीर्थसिंह रावत अद्य देहरादूने वार्ताहरान् प्रत्यपादयत् यत् चतुर्धाम यात्रा कृते वेब पोर्टल इति अन्तर्जालीय फलकं निर्धारित कार्यक्रमानुसारेण उद्घाटयिष्यते चत्र्णामपि धाम्ना तीर्थपुरोहिता अर्चकाश्च पूर्ववदेव विधि विधान पुरस्सरं पूजा अर्चना अन्ष्ठानानि च सम्पादयिष्यन्ति किन्त् भाविका भगवद्दर्शन कांक्षिण श्रद्धालव अर्चनानुष्ठानेषु प्रतिभागं कर्तु नैवानुमंस्यन्ते

भारते रूसस्य राजदूत निकोलाय क्दासेफ उक्तवान् यत् रूसीसंघदवारा भारत रूसयोरर्मध्ये रणनीतिक सहयोगानुरूपं कोविड नावदशस्य प्रबंधने सहयोगाय भारताय मानवीय सहायता संप्रेषणस्य निर्णयो निर्णीत

दिल्ल्यां अपराहणे सार्ध त्रिवादन तः मंबई इंडियंस दल राजस्थान रॉयल्स दलेन साक योत्स्यमानमस्ति अपरत्र च अहमदाबाद क्रीडाङ्गणे डेल्ही कैपिटल्स दलस्य साम्मुख्यं कोलकाता नाइट राइडर्स दलेन समं भविष्यति